इयं ही भारतस्य प्रथमा महिला क्रीडिका अस्ति

प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोक्तं यत् भारतस्य उपलब्धीनां लाभ न केवलं देशाय वर्तते अपित् समग्रमपि मानवतायै अस्ति अमुना एततु वक्तव्यं स्वतन्त्रभारतस्य पंचसप्ततितमवर्षोत्सवम् उपलक्ष्ये अद्य समायोज्ययाणे कार्यक्रमे समुदीरितम् असौ अद्य स्वतन्त्रताया अमृत महोत्सवस्य विविधगतिविधीनां श्रीगणेशस्य अपि च ग्जराते साबरमती आश्रमात् दार्ण्डी यावत् पदयात्राया श्भारंभावसरे जनसमुहं सम्बोधयति स्म श्रीमोदी अत्रैव देशस्य स्वतन्त्रताया पंचसप्ततितमस्य वर्षोत्सवस्य तात्पर्यं प्रबोधयता अस्यार्थ पंचसप्तति विचारा पंचसप्तति उपलब्धयः पंचसप्तति कार्याणि अपि च पंचसप्तति संकल्पा वर्तन्ते ये अस्मान् स्वतन्त्रभारतस्य स्वप्न साकारयित्ं प्रेरयन्ति अम्ना अत्रैव लवणम् आत्मनिर्भरताया प्रतीकत्वेन प्रख्यापितम् अस्माकं जीवनमूल्यै आत्मसम्मानै सह आंगलै लवणस्योपरि अपि प्रहृतम् पुन राष्ट्रपितरं महात्मागान्धिनं संस्मरता प्रोक्तं यत् महात्मा गान्धीवर्येण राष्ट्रपीडाया अन्भूति कृता उपायत्वेन नमक आन्दोलनाख्यस्य सैन्धव सत्याग्रह रूपेण जनानां मलसमस्यानिराकरणस्य सफल प्रयास विहित अत एव एतद्वि जन आन्दोलत्वेन प्रतिष्ठित नायड् अमृत महोत्सव उपराष्ट्रपतिना एम वेंकैया नायड्वर्येन भारतम् आर्थिकरूपेण सबलीकर्त् निर्धनोन्मूलन अशिक्षा भ्रष्टाचार स्त्रीप्रूषभेदभाव प्रभृतय सामाजिकक्रितीनां द्रीकरणार्थं कठोरप्रयासाय जना आकारिता अमुना अद्य फेसबुक इत्याख्ये समाजिकसंजाले स्वविचारान् प्रकटयता एतदपि उक्तं यत् अस्माक पार्श्वे न्यासरूपेण महात्मागान्धीसदृशा नैके स्वतन्त्रतासेनान्य सन्ति अवसरेऽस्मिन उपराष्ट्रपति अद्य समारब्धस्य साबरमतीत दाण्डीं यावत् पंचविंशतिदिनात्मकयात्राया एमल्लेख कृर्वन् एतदपि प्रख्यापयत् यत् अमृत महोत्सव भारतस्य कठिनपरिश्रमेणार्जितं स्वतन्त्रताया उत्सवो वर्तते एतद्वि स्वतन्त्राया पश्चात् भारतस्य पुननिर्माणस्य अलौकिक उत्सव अस्ति

अनेनैव सह केरलतमिलनाडुभ्यां साकं केन्द्रशासित पुदुच्चेरी प्रदेशेऽपि एकस्मिन्नेव चरणे जायमानाय निर्वाचनाय नामांकनप्रक्रियापि समारब्धा पश्चिमबंगालअसमयो प्रथमचरणात्मक निर्वाचनाय नामांकनप्रत्यावर्तनस्य अद्य अन्तिम दिवस आसीत् असमप्रदेशे सप्तचत्वारिशत् विधानसभाक्षेत्रेभ्य प्रथमचरणात्मकानि मतदानानि मार्चमासस्य सप्तविंशतितमे दिनांके भविष्यन्ति अस्थैव चरणस्य कृते पश्चिमबंगालप्रदेशे च विंशत् विधानसभाक्षेत्रेभ्य मतदानानि सम्पत्स्यन्ते अधैव च द्वितीयचरणातमकमतदानाय नामांकनपूरणस्य अन्तिमा तिथिरपि अस्ति केन्द्रशासितप्दच्चेरीप्रदेशेन साधं तमिलनाड़ केरलयो निर्वाचनानि अप्रैलमासस्य षष्ठ्यां तिथौ सममेव भविष्यन्ति

ब्रिक्स उपवेशनम् भारतस्य नेतृत्वे ब्रिक्सइत्याख्यस्य पंचदेशानां सम्पर्कसमूहस्य प्रथमम् अर्थवाणिज्याधारितम् उपवेशनम् मासस्यास्य नवमतालिकात एकादशपर्यन्तं संजातम् अस्य उपवेशनस्य विषय आसीत् ब्रिक्स एड फिफ्टीन निरन्तरता संघटनम् सामान्य सहमतिभ्य ब्रिक्ससमूहे पारस्परिकसहयोग इति भारतदेशेन उपवेशनेऽस्मिन आवर्षघटितघटनानां संभावितकार्यक्रमाणां च कलैण्डराख्या सारिणी प्रस्तुता अस्यां सारण्यां ब्रिक्सदेशानां मध्ये वाणिज्यिक मेलनानि चक्रीयोपवेशनानि अन्यानि च विचारविनिमयात्मकानि क्षेत्राणि सम्मिलितानि सन्ति ब्रिक्सदेशेष् सितम्बरमासान्तं यावत् विभिन्नेष् प्रसंगेष् विचार विनिययानि संभविष्यन्ति स्च्यौषधसखा अद्यावधि भारतेन सप्तति परिवेशिराष्ट्रेभ्य पंचाशीति लक्ष्याधिक पंचकोटि परिमितानि कोविडसूच्यौषधानि प्रदत्तानि इमानि सूच्यौधनानि भारतनिर्मितान्येव सन्ति प्रदत्तेषु सूच्यौषधिषु अशीतिलक्षात्मकानि निशुल्कतया वैक्सिन मैत्री इति योजनान्तर्गतानि सन्ति विदेशमन्त्रालयेन सूचितं यत् एकोनचत्वारिशत् लक्ष्यधिक त्रिकोटिसूच्यौषानि व्यावसायिकदृष्ट्या विभिन्नेभ्य पंचदशराष्ट्रेभ्य विक्रीतानि

स्वास्थ्यमन्त्रालयेन सूचितं यत् विगत चत्र्विंशतिहोरास् अशीतिसहसोत्तरचत्र्लक्षाधिकेभ्य कोविडमहामार्या सूच्यौषधानि प्रदत्तानि एतदन्तराले कोरोना स्वास्थतामानं अष्ट पंच दशमलवोत्तर षण्णवतिपरिमितम् अंकितम्

क्रिकेटस्पर्धा इंग्लैण्डभारतयोर्मध्ये विंशति विंशति क्रिकेट श्रृंखलाया प्रथमा क्रीडा अद्य कथ्वित्कालानन्तरम् एव अहमदाबादनगरस्थ नरेन्द्रमोदीक्रीडांणे भविष्यति